अद्य भारतेन तटक्षेत्रीयस्रक्षायै राष्ट्रियाभियानम् अभिलक्ष्य स्वीये समग्रेऽपि सम्द्रतटे अष्ट नीलध्वजा उत्तोलिता अद्य देशे कोरोनामाहामार्या सूच्यौषधिप्रदानस्य अभ्यास प्रारब्ध अस्य प्रथमचरणे आंध्र प्रदेश गुजरात पंजाब असम राज्येषु दिनद्वयस्य अभ्यासकार्यक्रम समारब्ध देशे कोरोनामहामारीतः स्वस्थीभूतानां जनानां प्रतिशतता सम्प्रति प्रवर्ध्य पञ्चनवति दशमलव अष्ट त्रि परिमिता संजाता मेलबर्न क्रिकेटस्पर्धाया द्वितीयपञ्चदिवसीयक्रीडाया तृतीयदिवसे भारतं सुदृढ़स्थितौ अस्ति

प्रधानमंत्री किसान रेल अद्य प्रधानमन्त्रिणा शततमं कृषिरेलयानं हरितध्वजप्रदर्शनपूर्वकं अग्रसारितम् आभासीय स्वोद्वोधने श्रीमोदिना उक्तं यत् किसान रेल सेवा इत्याख्या रेलमार्गीया सेवा कृषकाणाम् आयाभिवर्धिका अस्ति कृषि क्षेत्रसम्बद्वाम् अर्थव्यवस्थां परिवर्तनपथि नेष्यति इयं रेलसेवा सेवेयं सर्वकारस्य कृषकान् प्रति प्रतिबद्धतां प्रदर्शयति इत्यपि श्रीमोदिना निगदितम्

अवसरोऽय राष्ट्रस्य आधारभूतसंरचनायै जनाना सगम जीवनयापनार्थं च मंचम् उपस्थापयति श्रीमोदिना अद्य देहली मेट्रो इत्याख्यस्य यातायातसाधनस्य नीलातिरक्त वर्णीयस्य मेट्रोयानस्य चालकरहितं यानं समुद्वाटयन् आभासीय कार्यक्रमे उक्त सर्वकार संभावित आवश्यकतानुसारी नागरीय आधारभूतसंरचनायै प्रतिबद्ध अस्ति प्रधानमन्त्रिणा अग्रे प्रोक्त यत् सर्वकार स्थानीय आवश्यकतानाम् स्थानीयानाम् उत्पादानी च उच्चस्तरीय निर्माणाय प्रोत्साहयितुम् मेक इन इंडिया इत्युद्वोषस्य च विस्तारार्थं बलं ददाति तेन अग्रे उक्तं यत् यत्र चतुर्दशोत्तर द्विसहम्रतमे वर्षे आराष्ट्रे पञ्चसु नगरेषु एव मेट्रो यानस्य व्यवस्था आसीत् परं सम्प्रति अष्टादश नगरेषु व्यवस्थेयं चलायमाना अस्ति जावडेकर अद्य भारतेन तटक्षेत्रीयसुरक्षायै राष्ट्रियाभियानम् अभिलक्ष्य स्वीये समग्रेऽपि समुद्रतटे अष्ट नीलध्वजा उत्तोलिता इदमालक्ष्य पर्यावरणमन्त्रिणा प्रकाशजावडेकरेण प्रोक्त यत् भारतेन स्वीये प्रथमे एव प्रयासे सम्पृर्णमपि अघ्टसमुद्रक्षेत्रेभ्य ब्लू फलैग सर्टिफिकेशन इति उपाधिप्राप्त विषयेऽस्मिन् देशस्च विश्वस्य प्रथमो देश अभवत् अमुना द्रश्य श्रव्य प्रणाल्या ध्वजा उत्तोलिता

अस्य प्रथमचरणे आंध्र प्रदेश गुजरात पंजाब असम राज्येष् दिनद्वयस्य अभ्यासकार्यक्रम अद्य समारब्ध अस्य अभ्यासस्य उद्देश्यं सम्भावितसंकटान् विज्ञाय योजना च परिष्कत्य सुच्यौषधिप्रदानप्रक्रियां निर्वाधगत्या अग्रेनयनं वर्तते अस्य अभ्यासस्य सुचना नवदिल्लीस्थ सफदरगंज चिकित्सालयस्य चिकित्सकेन नीरज गुप्ता इत्याख्येन प्रदत्ता सहैव जनेभ्य कोरोनासंक्रमणविरूद्वय सुरक्षासाधनानि सरक्षोपकरणानि च धर्तम् आग्रह कृत भवन्त भवत्यश्च संस्कृतवार्ताया संस्करणमिदं इदानीम् आकाशवाणीत श्रण्वन्ति

सम्प्रति कोरोनामहामार्या मृत्युमानं एकदशमलव चत् पञ्चप्रतिशतं वर्तते ब्रिटेन कोविड ब्रिटेनदेशस्य दक्षिणक्षेत्रीयानां चिकित्सालयानां वक्तव्यमस्ति यत् निदानेच्छूनां जनानां सम्मर्देन चिकित्साव्यवस्थादातार भारमनुभवन्त सन्ति दिवसोऽयं बॉक्सिंग डे इत्याख्येन सुप्रसिद्ध दिवस रोगीवाहनाना व्यस्ततादृष्ट्या सर्वातिव्यस्त आसीत् प्रायस अष्टसहघ्रं यावत् संदेशा आदिनं लण्डन नगरीया चिकित्सासहायका लभन्त सन्ति अद्य ब्रिटेनदेशे सार्थंत्रिशत्सहघ्राणि नूतनप्रकराणानि षोडशोत्तरत्रिशतजनाश्च कालकवलिता जाता इति जेटले जयन्ती मोदीशाहौ प्रधानमन्त्रिणा नरेन्द्रमोदिना प्राक्तन भाजपा दलनेतुः स्वर्गीय श्री अरुणजेटली वर्य स्मरन् स्वट्वीटसन्देशे निगदितं यत् श्रीजेटलीवर्य प्रसन्नवदन प्रतिभासम्पन्न सुप्रसिद्धविधिवेत्ता आसीत् सर्वाणि मित्राणि तस्य न्यूनतां नैरन्तर्येण अन्भवन्ति अष्टषष्ठीतमे जन्मजयन्त्यावसरे जेटलीवर्यम् अनुस्मरन् गृहमन्त्रिणा अमितशाहेन भणितं यत् स उत्तम सांसद विभिन्नेष् विषयेष् कृताधिकारश्व आसीत् फिरोजशाह कोटलाभिधानेन सुप्रसिद्धस्य क्रिकेट क्रीडागंणस्य पुनर्नामकरणं अरुणजेटली स्टेडियम इति कुतम् क्रीडागणेऽस्मिन् श्री जेटलीवर्यस्य प्रतिमाया अनावरणावसरे भाषमाण आसीत् ग़हमन्त्री अमित शाह पीएम ईडीएफसी प्रधानमन्त्री नरेन्द्रमोदी श्व एकादशवादने दृश्य श्रव्यप्रणाल्या देशस्य पूर्वीभागेन सह सम्पर्काय समर्पितां ईडीएफसी इत्याख्या सेवां समुद्वाटयिष्यति एक पञ्चाशद्तर त्रिशतकिलोमीटरात्मकं नवभूप्रस्य ईडीएफसी इत्यस्य नव खूर्जाखण्डोऽयम् उत्तरप्रदेशे अस्ति सार्धपञ्च सहम्रकोटितोऽपि अधिकमूल्यै निर्मितेयं सेवा कानपुर फिरोजाबाद इटावा अलीगढ़ादिभ्य मण्डलेभ्य व्यवसाय संवर्धनाय महतीं भूमिकां निर्वक्ष्यति

यत्र प्रथमपाल्याम् आष्ट्रेलियादेश पञ्चोनद्विशतमेव धावनांकान् समर्जितवान्

इति वार्ता